प्रधानमन्त्री दक्षेससम्मेलनम् प्रधानमन्त्री श्रीनरेन्द्र मोदी दक्षेस देशान् न्यवेदयत् यत्ते आतंकवादं तस्य द्रुत्साहकानि बलानि च पराजेत् प्रभावशालि पदक्षेपान् गृहणीय् दक्षेस संघटनस्य प्रतिष्ठापना दिवसम् उपलक्ष्य तत्सचिवालयं प्रति विलिखिते पत्रे श्रीमोदिना स्पष्टीकृतं यद्क्तै पदक्षेपै दक्षेस संघटनस्य दृढीकरणे तत्र प्रबलतर विश्वास जनने च महत् साहाय्यम् अवाप्स्यते

मत गणनाया आरम्भ प्रात अष्ट वादने भविष्यति पूर्ण परिणामाश्च सायं यावत् स्पष्टीभवेय्

अत्रान्तरे अद्य झारखण्डस्य ग्मला जनपदान्तर्गतं सिसई निर्वाचन क्षेत्रस्य कृते प्नर्मतदानम् आयोज्यते तत्र विगत मतदानावधौ प्रभ्त हिंसोपद्रव घटनानां सूचनामन्सृत्य निर्वाचनायोगेन प्नर्मतदानमादिष्टम् आसीत् उत्तरप्रदेशप्रशासनम् उन्नाव उत्तरप्रदेश प्रशासनेन उन्नाव बलात्कार पीडिताया दहन घटना सन्दर्भे प्रमादिन सप्त आरक्ष्यधिकारिणो निलम्बिता गत ग्रुवासरीय प्रात यदा पीडिता न्यायालयं प्रति गमनोद्यता अवर्तत तदैव सा आरोपिभि सहसा दहनाग्निमारोपिता इति वार्ता